पटनायाम् एनडीएसङ्घटनस्य नवनिर्वाचितैः विधायकैः श्रीक्मारः स्वनेत्रूपेण चितः

शपथग्रहणसमारोहः श्वः भविष्यति राज्यपालः श्रीफाग्रचौहानः श्रीक्मारं तथा च तस्य मन्त्रिमण्डलस्य सदस्यान् पदस्य गोपनीयतायाः च शपथं दापयिष्यति नीतीशक्मारः सर्वसम्मत्या एनडीएसङ्घटनस्य नेता चितः पटनायां एनडीएसङ्घटनस्य संय्क्तोपवेशने एषः निर्णयः कृतः एतस्मात् पूर्व श्रीक्मारः जनतादलयूनाइटेड्विधायकैः स्वनेता चितः मुख्यमन्त्रिणः नीतीशक्मारस्य सर्वकारीयावासे इदम्पवेशनम् आहूतम् आसीत् रक्षामन्त्री राजनाथसिंहः पर्यवेक्षकत्वेन अस्मिन्पवेशने उपस्थितः आसीत् केन्द्रीयमन्त्री नित्यानन्दरायम् अतिरिच्य बिहारविषयाणां प्रभारी भूपेन्द्रयादवः निर्वाचनप्रभारी देवेन्द्रफडणवीसः तथा च बिहारभाजपाध्यक्षः सञ्जयजायसवालः अपि उपवेशने उपस्थिताः आसन् हिन्दुस्त्तान अवाम मोर्चादलस्य अध्यक्षः जीतनराममांझी तथा च विकासशील इंसान पार्टी इत्यस्य प्रमुखः मुकेशः साहनी अपि उपवेशने उपस्थिताः आसन् एनडीएसङ्घटनस्य सर्वाणि अपि चत्वारि दलानि मिलित्वा सर्वकारसङ्घटने विचारं कृतवन्तः उपम्ख्यमन्त्रिपदम् अतिरिच्य विधानसभायाः अध्यक्षचयनस्य तथा च अन्येषां विषयाणाम् उपरि चर्चा जाता स्शीलक्मारमोदी अद्य भाजपादलस्य विधायकनेत्रूपेण चितः एतस्मात् पूर्व जनतादलयूनाइटेड् हिन्द्रस्तान आवाम मोर्चा तथा च विकासशील इंसान पार्टी इत्येतैः दलैः स्वस्वदलनेतृणां चयनाय उपवेशनानि आसन् सद्य एव विधानसभानिर्वाचनेष् एनडीएसङ्घटनेन पञ्चविंशत्य्त्तरशतम् आसनानि विजित्य पूर्ण बह्मतं प्राप्तम् अस्ति एकेन निर्दलविधायकेन स्मितसिंहेन अपि एनडीएसङ्घटनाय स्वसमर्थनं दत्तम् अस्ति

श्रीनायडू ट्वीट् माध्यमेन उक्तवान् यत् धरतीआबाइति नाम्ना प्रसिद्धः बिरसा म्ण्डा आङ्ग्लीयानां दमनस्य विरुद्धं जनजातिजनान् एकत्रीकृतवान् तेनोक्तं यत् बिरसाम्ण्डायाः साहसः दृढनिश्यश्च अन्यायपूर्ण औपनिवेशिकशासनस्य विरुद्धं जनजातिजनान् एकत्रीकृतवान् उपराष्ट्रपतिना उक्तं बिरसा म्ण्डा जनजातिजनानाम् अधिकारसंरक्षणाय सर्वदा संस्मरिष्यते श्रीनायड्र झारखण्डस्य जनतायै राज्यस्थापनादिवसस्य श्भकामनाः प्रदत्तवान् तेनोक्तं यत् वनानां भूमिः झारखण्डः खनिजसम्पदां भूमिः तथा च अस्य क्षेत्रस्य जनाः राष्ट्रनिर्माणाय विभिन्नक्षेत्रेष् निरन्तरं योगदानं ददति प्रधानमन्त्री अपि ट्वीट् द्वारा बिरसाम्ण्डायाः जन्मदिवसोपलक्ष्ये तस्मै श्रद्धाञ्जलिम् अर्पितवान् प्रधानमन्त्रिणा उक्तं यत् बिरसाम्ण्डा वास्तविकार्थेष् निर्धनजननायकः आसीत् तथा च तेन समाजस्य वञ्चितानां पीडितानां च जनानां हिताय कार्य कृतम् श्रीमोदिना उक्तं यत् स्वतन्त्रतान्दोलने तस्य योगदानं तथा च सामाजिकसद्भावं प्रति प्रयत्नाः जनान् सदैव प्रेरयिष्यन्ति प्रधनमन्त्री झारखण्डस्य जनतायै राज्यस्थापनादिवसस्य अपि श्भकामनाः प्रदत्तवान्

नियन्त्रणरेखायां श्क्रवासरे अकारणमेव प्रारब्धं संघर्षविरामोल्लंघनमवलम्ब्य भारतेन एष विरोधपरक पदक्रम उत्थापित विदेशमंत्रालय पाकिस्तानीय उच्चायोगस्य उप उच्चाय्क्तं समाहय ऐषम त्रयोदश्यां तिथौ द्रापादिताक्रमणं विरुद्ध्य स्वीयां कठोरप्रतिक्रियां अभिवव्यत्तवान् ध्येयमस्ति यत् उक्तदिनांके जम्मू कश्मीरस्य नैकेष् क्षेत्रेष् पाकिस्तानपक्षत गोलिकाप्रहारा विहिता आसन् अत्र प्रहारे नागरिकचत्ष्टयं आसीत् दिवंगतम् त्रयोदश अन्ये च व्रणिता संजाता भारतेन सबलं प्रतिपादितं यत् पाकिस्तानभटै निरपराधिनां नागरिकाणां हननं भ़शं निन्दनीयं कार्यजातमस्ति

विगते नक्तंदिवे भूयोपि दविचत्वारिशतसहस्रं महामारिपीडिता चिकित्सावकाशं गता स्वास्थ्यमंत्रालयेन विज्ञापितं यत् विषाणो आरोग्यमाप्तवतां जनानां संख्या समेध्य सम्प्रति दव्यशीतितोप्यधिका संजातास्ति भारते नूतनत्वेन संक्रमणग्रस्तानां मानं सम्पूर्णसंख्यापेक्षया पंचदशमलवचत्श्चत्वारिंशन्मितम् एवास्ति अवशिष्टम् इदानीं भारते महामार्या सक्रियप्रकरणानि सन्ति नवसप्तत्य्त्तरचत्लक्षसंख्याकानि स्वास्थ्यमंत्रालयान्सारि प्रशासनेन यथासमयं यथावश्यकं विहितेन प्रभाविरणनीते सफलक्रियान्वयनेनैव स्वस्थतांगतानां मितौ महत्परिष्कारो दरीदृश्यते मृत्य्मितौ च अपचिति परिलक्ष्यते इदानीं देशे संक्रमणेन कालकवलितानां प्रतिशतता एकदशमलव चत्सप्त परिमिता विद्यते मानमिदम् विश्वापेक्षया वर्तते न्यूनतमम् विगतास् चत्र्विशतिहोरास् सप्तचत्वारिशद्रत्तर चत्शतं संक्रमिता प्राणान् अत्यजन् इत्थम् अद्यावधि मृतकानां संख्या आहत्य पंचत्रिंशद्रत्तर षट्शताधिक ऊनत्रिंशज्जना पंचत्वे निलीना अपरत भारतीय आय्र्विज्ञान अन्संधान परिषदान्ग्णं गते अहोरात्रे भूयोपि पंचलक्षोत्तर अष्ट संख्याकानि कोरोना प्रतिदर्श परीक्षणानि विहितानि एवं अद्यावधि राष्ट्रे अष्टचत्वारिंशल्लक्षोत्तर द्वादशकोटिपरीक्षणानि संजातानि

पंचाशीतिवर्षीय सौमित्रवर्य कोलकाताया एकस्मिन् चिकित्सालये प्राणैर्विय्क्त कोरोनासंक्रमितः चैटर्जीवर्य गतमासस्य षष्ठे दिनांके चिकित्सालये प्रवेशित आसीत् चिकित्सालयस्य सुत्रानुसारि संक्रमणात् असौ विमुक्त संजात किंच नानारोगद्ष्प्रभावकारणं हि मृत्य्बन्ध

चलच्चित्रं इदम् सत्यजीत रे वर्यस्य निर्देशने निर्मितं आसीत् यस्मिन् अप्पात्रत्वेन चैटर्जीवर्यस्य अभिनय आसीत् रुग्णावस्थाया प्राक् असौ चलच्चित्रजगति सक्रिय अवर्तत रंगमंचस्य प्रख्यात व्यक्तित्व कविश्च सौमित्रचटर्जी प्रशसंकेष् लोकप्रिय आसीत् बंगालस्य सांस्कृतिकजगति असौ महा प्रसिद्धः अवर्तत देशे विदेशेष् चापि असौ नैकप्रस्कारै उपायनीकृतो जात